कर्णाटक राजनीतिक संकटम् कर्णाटके राजनीतिकं संकटम् अवलम्ब्य भाजपा दलीयं शिष्टमण्डलमेकम् अद्य बेंगलूरौ राज्यपालेन वजुभाई वाला इत्यमुना सार्धम् अमिलत् उपवेशनानन्तर सब्चार माध्यम आक सम्भाषणावसरे दलस्य प्रदेशाध्यक्षेण वी एस येदियुरप्पा इत्यमुना भणितं यत् मुख्यमन्त्रिण एच डी कुमारस्वामिन पदत्यागस्य समय आगतोऽस्ति

यतोहि तस्य प्रशासनम अल्पमते समापतितमस्ति अनेनोक्तं यत् सदने बहमत साधनस्यापि आवश्यकता नद्यास्ति यतोहि प्रशासनस्य पार्श्वे बहमतमेव नास्ति अपरत्र च मुम्बई आरक्षिबलेन कर्णाटकस्य वरिष्ठ कांग्रेस नेत्ः डी के कुमार स्वामिनो विरोधे प्रदर्शनानि निध्याय पवई क्षेत्रे जुलाई द्वादशीं यावत् सब्चाररोधादेश प्रवर्तितोऽस्ति एतदन्तर्गतं चतुरधिक जनानां एकत्रीभवनं निषिध्यते अत पूर्व शिवक्मार मुम्बय्याम् एकस्मिन् होटलाख्ये महाशनालये विरोधि विधायकान् मेलित्ं गत आसीत् किन्त् मुम्बई आरक्षिबलेन असौ मेलनात् पूर्वमेव अवरोधित अत्रान्तरे कांग्रसस्य जनता दल सखिलर दलस्य च विरोधि विधायक्त सर्वोच्च न्यायालये विहित निवेदनेन राजनीतिकं संकटम् अतोऽपि गम्भीरायतेतराम्

नवदिल्ल्यां वार्ताहर साकं सम्भाषमाणेन सूचना प्रसाण मन्त्रिणा प्रकाश जावडेकरेण प्रोक्तं यत् योजनाया अन्तर्गतं ग्रामीण कृषि आपणानां च संयोजक मार्गाणां प्रम्ख ग्रामीण सम्पर्क माध्यम समेकनं सम्मिलितमस्ति योजनाया तृतीया चरणस्य अन्तर्गतं विभिन्न राज्येष् पञ्चविंशत्त्युत्त एक लक्ष किलोमीटर मित लम्बायमान मार्गाणां विरचनस्य लक्ष्यमस्ति